हरियाणाया कृषकनेतार ह्य कृषिविधेयकसर्मथन संदर्भे नवदिल्ल्यां कृषिमंत्रिणा नरेन्द्रसिंह तोमरेण सह सम्मेलनम् अक्र्वन् प्रधानमन्त्रिणा नरेन्द्र मोदिना देशे महामारीजन्यप्रकोपात् जायमानायाम् उन्नतावनतस्थितौ परिस्कारगतौ प्रसन्नता व्यक्ता भारतीय अंतरिक्ष अन्संधान परिषदा सीएमएस् एकम् इति उपग्रहस्य प्रक्षेपणं अस्मिन् मासे सप्तदशदिनांके सुनिश्चितं कृतम् अस्ति कोरोणा महामार्या विरुध्य भारतं निरन्तरं साफल्य पथे अग्रसर अस्ति स्वस्थता प्रतिशतम् संवर्ध्य पञ्चनवति दशमलव अष्ट नव परिमितं जातम् चाबहार जलपोतस्थानविषयकं सम्मेलनं श्वो भविष्यति

भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य सड्ल्पं स्वीकुर्वन्तु म्खावरंक सन्धारयन्त् सामाजिकदौर्य परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

प्रधानमंत्री जलवाय् ईहा सम्मेलने भाषमाण आसीत् श्रोमोदिनोक्तं यत् भारतेन अस्य सौरोर्जाक्षमता अभिवर्धिता चत्र्दश उत्तर द्विसहस्रतमे वर्षे षट् त्रि दशमलवोत्तर द्वि गीगावाटमितं या आसीत् सा अध्ना वर्तमानसमये षटत्रिंशत् गीगावाट्मितं वर्तते

मेलनानन्तरं वार्ताहरै सह वार्ता क्वन् श्रीतोमर अवादीत् यत् कृषकनेतृभि कृषिविधेयकस्य सर्मथने लिखितपत्राणि समर्पितानि तेनोक्तं यत् कृषकै एतदपि ज्ञापितं यत् इमे नियमा कृषकाणां हिताय वर्तन्ते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 हय नवदेहल्यां फिक्की इत्याख्यस्य भारतीय उद्योग एवं च वाणिज्यमण्डल परिसंघस्य त्रिनवतितमे वार्षिकोपवेशने प्रधानमन्त्रिणा उक्तं यत् आर्थिक संकेतेभ्य नवीना आशा जागरिता

इसरो भारतीय अंतरिक्ष अन्संधान परिषदा सीएमएस् एकम् इति उपग्रहस्य प्रक्षेपणं अस्मिन् मासे सप्तदशदिनांके सूनिश्चितं कृतम् अस्ति एतद्पग्रह सी बैण्ड इत्याख्य आवृतिं अण्डमान निकोबार दवीपसमूहं यावत् विशेषेण प्रापयिष्यति कोरोणा कोरोणा महामार्या विरुध्य भारतं निरन्तरं साफल्य पथे अग्रसर अस्ति स्वस्थता प्रतिशतम संवर्ध्य पञ्चनवति दशमलव अष्ट नव परिमितं जातम् विगते अहोरात्रे त्रयस्त्रिंशत्सहस्राद अधिका जना स्वस्थतां गता

चाबहार चाबहार जलपोतस्थानविषयकं सम्मेलनं श्वो भविष्यति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 अनया वार्तया व्यापारिण व्यापरसमुदायाश्च लाभान्विता भविष्यन्ति